राष्ट्रपतिना रामनाथ कोविंदेन समुदीरिंत यत् स्वार्थ विहाय कोरोनामहामारीशमनार्थ कार्यरता चिकित्सका स्वास्थ्यकर्मिणश्च देशस्य गौरवभूता सन्ति

उत्तरखंडराज्यस्य चमोलि जनपदे तपोवनक्षेत्रस्य रैणीग्रामे हिमस्खलनेन धौलीगंगाया जलस्तर तीव्रगत्या वर्धते सूचना प्रसारणमन्त्रिणा प्रकाशजावडेकरमहोदयेन प्णे नगरे कोरोनामहामार्या सूच्यौषधि जागरण अभियानस्य श्भारम्भो विहित कोविड ओपनिंग कोरोणामहामारीं प्रति संघर्षे देश ऐक्यभावनया युदध्यते भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्य परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अमुना असम माला कार्यक्रमस्य श्भारम्भात् पर जनसभासम्बोधयन् कार्यक्रमस्य उद्देश्यत्वेन राज्ये मार्गगताधारभृत संरचनाना विकास अन्येष् राज्येषु मार्ग सम्पर्कस्थापनमपि च आर्थिकप्रगति प्रदान प्रतिपादितम् तत्रैव श्रीमोदिना असमराज्ये सघ प्रारम्भित विकासपरियोजनानां समुल्लेख कुर्बन एतदपि संसूचित यत् सम्पूर्णमपिपूर्वोत्तर प्रान्त विकासस्य मार्गे अग्रसरोऽस्ति अस्मिन् विकासपथि असमराज्यं महत्वपूर्ण स्थानं संघत्ते विंशति उत्तर षोडश वर्ष यावत् असमराज्ये चिकीत्सामहाविद्यालयानां संख्या षडेव आसीत् परंत् विगतपञ्चवर्षेष् एवं षड् चिकित्सामहाविद्यालया समुद्रघाटिता अत्रैव एमदपि समुदीरिंत यत अस्य वर्षस्य केन्द्रिय वित्तसंडल्पनापत्रेऽपि अत्रत्य चायक्षेत्रे कार्यरतानां कर्मकराणां कल्याणार्थम् एकसहस्रकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति श्रीमोदी अत्रैव पश्चिम बंगस्थ हल्दिया स्थानके भारत पेट्रोलियम कार्पोरेशन इत्यस्य प्राकृतिक तैल आयात स्थानस्य लोकार्पण करिष्यति राष्ट्रपति कोविड राष्ट्रपतिना रामनाथ कोविंदेन सम्दीरित यत् स्वार्थं विना कोरोनामहामारी शमनार्थं कार्यरता चिकीत्सका स्वास्थकर्मिणेश्च देशस्य गौरवभूता सन्ति अनेन वक्तव्य बेंगलुरूस्थ राजीवगान्धी स्वास्थ्य विज्ञानमहाविद्यालयस्य त्रयोविंशति तमे दीक्षान्तसमारोहे प्रोक्तम् अत्रैव स्वास्थ्य क्षेत्रस्य विकासाय सर्वेषां परस्परसहयोगस्य महती आवश्यकता विद्यते इति प्रतिपादितम्

स्वास्थ्य एवं परिवार कल्याण मन्त्रालयेन सूचितं यत् विगत चत्र्विंशतिहोरास् सार्धत्रिलक्षधिकेभ्य जनेभ्य कोरोनामहामार्या सूच्यौषधि दत्ता सम्प्रति देशे कोरोनामहामार्या स्वस्थतामानं सप्तनवति दशमलव एकं नव प्रतिशतं वर्तते विगते अहोरात्रे द्वादशसहस्राधिका जना महामारीत स्वस्थीभूय गृहं प्रत्यागता तत्रैव ऊनषष्ठयोतर द्वादशसहस्रजनाश्च संक्रमणप्रस्ता अभूवन् स्वास्थ्यमन्त्रालयानुसारी विगतचत्विंशति होरासुअण्सप्तति जना कोरोनाममहामारी कारणात् कालकवलिता

अस्मिन् उपक्रमे संयुक्तराज्य अमेरिका अपि च ब्रिटेनदेश प्रथमद्वितीयस्थाने वर्तेते स्वास्थ्यमन्त्रालयेन सूचितं यत् अद्य द्वादशराज्यै द्विलक्षाधिकजना सूच्यौषधप्रदानेन लाभान्वित कृत

अमुना क्षेत्रीयलोकसंम्पर्क एवं सञ्चार विभागेन समायोजिते कार्यक्रमे भागं गहन् उक्तं यत् भारतमेव प्रथमो देश वर्तते यत्र हि पंचाशत्सहसाधिकेभ्य जनेभ्य सूच्यौषधि प्रदत्ता अत्रैव जागरुकताभियान सब्वालनस्य उद्देश्यत्वेन भ्रामकवार्तानां निराकरणम् इत्यपि अमुना सूचितम् अस्मिन् अभियाने विभिन्नकार्यक्रमै अष्टशताधिका कलाकारा कोरोनामहामार्या अपि च सूच्यौषधस्य विषये जनेष् जागरुकतां वर्धयिष्यम्ति उत्तराखण्ड हिमस्खनम् उत्तराखंडराज्यस्य चमोलि जनपदे तपोवनक्षेत्रस्य रैणीप्रामे हिमस्खलनेन धौलीगंगाया जलस्तर तीव्रगत्या वर्धते एतत्कारणात् निकटक्षेत्रेष् जलाप्लावस्य संकटापन्न अस्मिन् जलाप्लवे गंगाजलविद्यूत् परियोजनायां कार्यरता कर्मकरा विल्प्ता अपि च कानिचन गृहाणि क्षतिग्रस्तानि जातानि एतत्सम्बद्धाम् सुरक्षोपायार्थ राज्यसर्वकारेण उचितनिर्देशा पदक्षेपाश्च सद्य एव स्वीकृत प्रधानमन्त्रिणा जलाप्लवस्य स्थिते समीक्षा विहीता अपि च राज्यस्य मुख्यमन्त्रिणा वरिष्ठ अधिकारिभि च साकं वार्ता कृता

ह्य प्रधानमन्त्री गुजरात उच्च न्यायालयस्य हीरकजयन्ति समारोहे आभासीयप्रणाल्या संबोधयन्नासीत् तेनोक्तम् विध्यादेश भारतीय संस्कृते मानवीयमूल्यानां च आधार अस्ति अयमेव च सुशासनस्यापि आधारो वर्तते अनेनैव हि अस्मत् स्वाधीनता सेनानिभ्यः सबंलं दत्तम् स्वराजस्यापि अवधारणा अनेनैव सृष्टा येन भारतस्य स्वतंत्रतासंग्रामाय अपि शक्ति दत्ता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

श्रीमोदिना उक्तं यत् संविधानानुसारं प्रत्येकस्मै नागरिकाय अधिकारा प्रदत्ता सन्ति जनसामान्येभ्य संघर्षाय शक्ति न्यायपालिकया एव दत्ता